राष्ट्रिय राजधान्यां दिल्लयां महिलानामेकेन समूहेन त्रितलाकोच्चार प्रतिषेधकस्य अस्य ऐतिहासिक विधेयकस्य समानयनाथं प्रधानमंत्रिने कार्तज्ञयं प्रकटितम् सूचना प्रसारण मन्त्रिणा प्रकाशजावडेकरेन इमा महिला सम्बोधित अनेनोक्तं यत् पूववर्ति प्रशासनै मत साधनस्य राजनीति करणेन त्रितलाकोच्चारे प्रतिबन्धो नैव प्रवर्तित जावडेकरेण निगदित यत् अधिकांश मुस्लिम देशेष् पूर्वत एवं त्रितलाकोच्चारे प्रतिबन्धो वर्तते अशेषादिपि देशात् सन्दर्भे आस्मिन् मोदिने वर्धापनानि आयान्ति प्रधानमंत्रिणा श्रीमोदिना विधेयकस्य अभ्युपगते सति नारीशक्त्या विजय प्रतिपादित

शीर्ष न्यायालय उन्नावदृष्कर्म सर्वोच्च न्यायालयेन अद्य उन्नाव दष्कर्म पीडिताया दर्घटना विषये उत्तर प्रदेश प्रशासन प्राधिकरण परिपृष्ट यत् तत् विषयोस्मिन श्वपर्यन्तं साम्प्रतिकीं स्थितिं स्पष्टीकर्यात प्रधान न्यायाधीशस्य आध्यक्ष्य युतेन पीठेन प्रकरणेस्मिन श्व वादश्रवणं करिष्यते सर्वोच्च न्यायालयेन स्वकीय महासचिवाद विवरणम् अभियाचितमस्ति यत् उन्नाव दृष्कर्म पीडितया प्रधान न्यायाधीशाय रंजन गोगोई इत्यस्मै लिखितं पत्रं तस्य सम्मुखं किमर्थं नैव प्रस्तुतमिति पत्रे महिलाया लिखितम् आसीत् यत् तद्परि प्राणसंकटमस्ति अथ च तान् विरूध्य प्राथमिकी पंजीकरणस्यापि निर्देशस्य याचना विहिता आसीत् यै तत्परिवाराय कथित तर्जना प्रदत्ता आसीत् रंजनगोगोई इत्यस्य आध्याक्षय्ते पीठे न्यामूर्ति दीपकग्प्ता अनिरूद्ध बोसश्चापित समाविष्टौ स्त पीठेन पत्र पत्रिकास् प्रकाशित वार्तास् अपि दखं प्रकाशित यास् प्रधान न्यायाधीशस्य मृषा कार्यान्वयन शैशिल्यं प्रतिपादितमस्ति सीबीआई कुलदीपसिंह सीबीआई अभिकरणे उन्नाव दृष्कर्म पीडिताया मार्गीय दर्घटना प्रकरणे भाजपादलीय निलम्बित विधायके कुलदीपसिंह सेंगरे दश अन्येषु च हत्याया प्रकरणं पंजीकारितम्